निर्भया सामूहिक दृष्कृति हत्या प्रकरणे पुनर्विचार याचिका सर्वोच्च न्यायालयेनाद्य निरस्ता सर्वोच्च न्यायालयेन व्यवस्थापितं यत् जम्मूकश्मीरात् सप्तत्यधिक त्रि शत संख्याकम् अनुच्छेद प्रकरणम् वादश्रवणार्थं सप्तन्यायाधीशेभ्य नैव प्रेषयिष्यते विदेशमन्त्री एस् जयशंकर व्याहरत् यत् आतंकवादं विरूद्वय भारतेन समृत्थापितात् कठोर पदक्रम वशादेव साम्प्रतं प्रमुख विश्व मञ्चेषु आतंक विषय परिचर्च्यते

दिल्ली हिंसा घटनामवलम्ब्य विपक्षिदलैः सदनद्वयो कार्यजातानि स्थगनार्थं बाधितानि राज्यसभायां उक्त विषयमालक्ष्य विपक्षि सदस्यानां स्थगन प्रस्तावं वर्णयन् सभापति एम् वेंकैया नायडू अचकथत् यत् दिल्या हिंसा प्रभावितेष् उत्तर पूर्वीय भागेष् स्थितिं समान्यीकर्त् अस्माभि प्रामुख्येण प्रयतितव्यम् शान्त्यूपस्थापनानन्तरमेव विषये परिचर्चा सम्भवा पुनरपि अनारतं कृत कोलाहल कारणात् राज्यसभा कार्याणि स्थगितुं बाधितानि द्वि वादने प्नर्कार्यारम्भे विपक्षि दल सदस्यै राज्यसभाया मध्यभागे उत्क्रम्य प्रशासनस्य विरोधे स्वरा तीव्रीकृता समाना एव स्थिति लोकसभाया अपि अवर्तत

स्थगनानन्तरं पुनः समारव्ये राज्यसभा कार्यजाते मानव संसाधन विकास मन्त्रिणा रमेश पोखरियाल निशंक वर्येण संस्कृत भाषाया महत्वं समुपवर्णयता विधेयकमिदं उपस्थात्मु अमुनोक्तं यत् विधेयकान्मोदनानन्तरं देशस्य मानित संस्कृत विद्यापीठ त्रयं केन्द्रीय संस्कृत विश्व विद्यालयत्वेन प्रतिष्ठापयिष्यते विद्यापीठत्रये नवदिल्या राष्ट्रिय संस्कृत संस्थानम् श्री लालबहाद्र शास्नि राष्ट्रिय संस्कृत विद्यापीठं तिरूपतिस्थं च राष्ट्रिय संस्कृत विद्यापीठं समवेतानि सन्ति शीर्षन्यायालय निर्भया सामूहिक दृष्कृति हत्या प्रकरणे मृत्युदण्डेन दण्डितेष् चतृर्ष् आरोपितेष् एकेन पवन ग्प्तेन पब्जीकृता पुनर्विचार याचिका सर्वोच्च न्यायालयेनाद्य निरस्ता याचिकाया वादश्रवणं पञ्चन्यायाधीशयुतं खण्डपीठं करोति स्म ध्येयमस्ति यत् मार्च तृतीयायां पवनग्प्तं समेत्य चतुभ्योंऽपि दोषिभ्य पटियाला हाउस न्यायालयेन मृत्युदण्ड श्रावित आसीत् अत्रान्तरे शीर्षन्यायालयरस्य दया याचिका निरसनात्मकं निर्णयानन्तरं पवनग्रंतेन तदीय मृत्युदण्ड आजीवन कारावास दण्डत्वेन परिवर्तयितुं राष्ट्रपति अध्यर्थितोऽस्ति

ध्येयमस्ति यत् गतवर्षे ऑगस्टमासे केन्द्रेण उक्तानुच्छेदोपसारण निर्णय विहित आसीत्